राज्यसभया विंशति अधिक द्विसहस्रतमं महापत्तन प्राधिकरण विधेयकं पारितम् निर्वाचनायोगस्य दलैकम् तमिलनाडु राज्यस्य निर्वाचनमुपलक्ष्य सन्नद्धतां संद्रष्ट्र्ं राज्ये अस्ति आराष्ट्रे सम्प्रतिं यावत षड्षष्टिलक्षाधिकै जनै सुच्यौषधि अधिगत सममेव कोरोनामहामार्या स्वस्थतामिति सप्तनवति दशमलव द्वि सप्त मिता जाता अमेरिकाभारतयो विदेश मन्त्रिणौ हिन्दप्रशान्तक्षेत्रस्य स्थिते समीक्षणाय दौरभाषिकीं चर्चा चर्चितवन्तौ

विधेयकेस्मिन् पक्षे चत्रशीति विपक्षे च चत्श्चत्वारिंशत् मतविभाजनं जातम् अस्य विधेकस्य उद्देश्यं देशस्य प्रम्ख पोतस्थानकानां विनियमन संचालन प्रावधानै सह तेभ्य अधिक्येन स्वायत्तता दानमपि अस्ति विधेयकमिदं प्राक्तनस्य पोतस्थानक न्यास अधिनियमस्य स्थानं नेष्यति

तत्रैव देशे कोरोनामहामार्या स्वस्थता प्रतिशतता सम्प्रति सप्तनवति दशमलव द्वि सप्तमिता उल्लिखिता